श्वो भविष्यमाणय ईदपर्वण कृते प्रशासनेन उद्गृष्ट राज्यीयाधिकारिभ्य जनताभ्यश्व साहाय्यम्

अमितशाह गृहमन्त्रिणा अमितशाहेन ईरितं यत् जम्मू कश्मीर सप्तत्युतरत्रिशदन्च्छेदम् अपसारणात् प्रदेशेऽस्मिन् आतंकवादस्य निरसनं भविष्यति अथ च विकासमार्ग सुतरा प्रवर्धयिष्यति अद्य अमितशाह चेन्न्यां उपराष्ट्रपते एम वेंकैयानायडो एकस्य प्स्तकस्य विमोचनकार्यक्रमे भाषमाण आसीत् तेनोक्त यत् देशहिताय अयं अनुच्छेद अपाकृत अस्ति गृहमन्त्रिणा उपराष्ट्रपते वर्षद्रय कार्यकालावधौ विरचित पुस्तक लिसनिंग लर्निंग एंड लीडिंग इत्यस्य विमोचन विहितम्

जनाना कल्याणाय शान्तये प्रगतये हर्षप्रकर्षाय च प्रार्थना अपि कृता

प्राशासनिकसूत्रान्सारि ज्ञायते यत रेलविभागेन विगतपञ्चदिवसावधौ पञ्चाशतादधिक श्रमिकाणा स्वकीयराज्ये प्रवर्तनाय साहाय्य कृतमृ अस्ति गर्जरोत्सव जम्मूकश्मीरस्य गुर्जर बकरवाल समुदायेन अद्य जम्मूस्थितं भारतीयजनतापार्टी इति दलस्य मुख्यालयं निकषा जश्न ए आज़ादी उत्सवत्वेन आमानित जनेभ्य मिट्टान्नानि अपि वितरितानि अवसरेऽस्मिन् तै नृत्यगीतसंगीतादि प्रदर्शनमपि आचरितम् उत्सवस्यास्य नेतृत्वं भाजपा अनुसुचित जाति मोर्चा इत्यस्य प्रदेशाध्यक्ष चौधरी हारुन कुर्वाण आसीत आकाशवाण्या सह कृतवार्तायां ग्र्जर बकरवाल समुदायेन प्रतिपादितं यत् ते दशकेभ्य परतन्त्रता निगडनाद् अध्ना स्वातन्त्रयम् अनुभवन्ता तोयप्लव भारतीयरेलवे रेलमन्त्रालय तोयप्लवप्रभावितेभ्य महाराष्ट्र कर्नाटक केरल राज्येभ्य उद्घारसामग्री प्रेषणार्थं न किमपि सामप्रीवहनशुल्कं स्वीकरिष्यति एकस्मिन् ट्वीटलेखे रेलमन्त्री पीयूषगोयलेन जनेभ्य संघटनेभ्यश्व तोयप्लवप्रभावितराज्येभ्य अधिकाधिक उद्धारसामग्रीप्रेषणाय अध्यर्थना विहिता अस्ति

यया प्रभावितक्षेत्रेष् पर्यवेक्षणस्य जीवनरक्षाभियानस्य च कार्ये द्रतगति दृश्यते प्राशासनिकस्त्रै ज्ञापितं यत् विगत कतिपय दिवसावधौ राज्ये वृष्टिभ्स्खलनयो प्राकृतिकापदायां षष्टित अधिकजना मृता सन्ति महाराष्ट्रे तयोप्ल स्थिति शनै शन्ता सुरक्षाकार्याणि च तीव्रगत्या प्रचलन्ति अध्ना यावत् प्रदेशेऽस्मिन् चत्र्लक्षजना पञ्चदिवसावधौ सुरक्षितस्थानेषु प्रापितास्सन्ति राहुलवायनाडतोयप्लव कांप्रेस नेता राहुलगांधी केरले स्वकीये लोकसभा क्षेत्रे वायनाडे जीवनरक्षा शिविराणां निरीक्षणं करिष्यति अथ च तोयप्लवप्रभावितक्षेत्रेषु उद्धार उपायाना समीक्षा विधास्यति एकस्मिन् ट्वीट् सन्देशे तेन अलेखि यत् स आगामिदिवसेसु स्वकीय निर्वाचनक्षेत्रे स्थास्यति जनपदीय राज्ययीय अधिकारिभ्यश्च साक विचार विमर्श करिष्यति अमितशाह कर्नाटक केन्द्रीयो गृहमन्त्री अमितशाह अद्य कर्नाटकस्य बेलागावी इति स्थले तोयप्लवग्रस्तक्षेत्रेषु आकाशीयसर्वेक्षणं विदधाति सर्वेक्षणावसरे कर्नाटकस्य मुख्यमन्त्री बीएस येदियुरप्पा अपि तेन साकमस्ति तोयप्लवपीडितेभ्य प्रशासनेन सप्तत्युत्तरत्रिंशत् उद्धारशिविराणि स्थापितानि सन्ति